प्रधानमन्त्री नरेन्द्रमोदी प्रवोचत् यत् तदीयं प्रशासनं निर्धानानां कल्याणाय कार्यमाचरति कांप्रेसनेता राहूलगांधी प्रत्यपादयत् यत् भाजपादलं मूलविषयेभ्यो जनान् पृथक्करोति जम्मूकश्मीर अवशिष्टक्षेत्रेभ्यः अद्य मध्याहनात् पोस्टपैड इति सेवोत्तरश्ल्कप्रदेय सचलदरभाषसेवा पुनराप्स्यते

भारत दक्षिणाफ्रिकादेशयोः महिलानाम् एकदिवसीयक्रिकेट शृङ्खलायाः तृतीयान्तिमस्पर्धा अद्य क्रीडिष्यते

विभिन्न राजनीतिकदलानां दिग्गज नेतारः निर्वाचन जनसभाः सम्बोधयन्ति महाराष्ट्रे ह्यः भाजपादलस्य वरिष्ठनेता प्रधानमन्त्री नरेन्द्रमोदी जलगांवे प्रथमां जनसभा सम्बोधितवान् तदनन्तरम् असौ भंडारा गोदिया क्षेत्रयोः अपि जनसभां सम्बोधितवान्

अपरत्र भाजपाध्यक्षः अमित शाहः कोल्हापुरे जनसभा समबोधयत्

अनेन चक्रवातेन इदानीं यावत् त्रयश्त्रिंशज्जनाः पञ्चताङेगताः नैके च व्रणिताः घटनाम् आलक्ष्य प्रधानमन्त्रिणा नरेन्द्रमोदिना गभीरशोकः प्रकटितः

श्रीमोदिना ट्वीट सन्देशे व्यलेखि यत् विपत्तिकाले भारतं जापेन सह विद्यते

प्रशासनस्य प्रवक्ता रोहितकंसल श्रीनगरे विवरणमिदम् उपस्थापयत् राज्ये प्रतिबन्धापकरणदिशि महत्त्वपूर्ण पदक्षेपोऽयं वर्तते

स्रोतोभिः सूचितं यत् पाकिस्तानीय सैन्यबलेन अकारणमेव भारतीयस्थात्राणि लक्ष्यीकृत्य शनिवासरात् गोलिका प्रहारः प्रारब्धः भारतीयभटैः पाकिस्तानाय यथोचित्तमुत्तरं प्रदत्तम्

सम्मेलने अशेषे देशे एकीकृत विद्युत समवायैः सह सन्धि ज्ञापनेष् हस्ताक्षराणि भविष्यन्ति जीएसटी ई वे इति प्रणाल्या सह फास्टैग इत्सस्य एकीकरणार्थं भारतीय राजमार्ग प्रबंधनसमवायस्य वस्त सेवाकर परिषदः इत्यनयोर्मध्ये श्वः सन्धिज्ञापने हस्ताक्षरं भविष्यति

मुख्यन्यायाधीशस्य न्यायमूर्तेः रव्जनगोगोईनः अध्यक्षतायां पञ्चन्यायाधीशानां पीठेन ग्रुवासरं यावत् वादश्रवणं विधास्यते सम्भाव्यते यत् नवम्बर मासस्य सप्नदश दिनांके विषयेऽस्मिन् निर्णयः आगमिष्यति तस्मिन् एव दिने मुख्यन्यायाधीशः सेवामुक्तो भविष्यति